जम्मु कश्मीरे केन्द्र शासित प्रशासनेन वृष्टिजलं संरक्ष्य सद्वपयोगी करणार्थ बहव योजना समारब्धा राज्यसभा अन्तर्जालम् केन्द्र प्रशासनेन अन्तर्जाल ब्राडबैण्ड संयोजन सौविध्यर्थ आगामि वर्षस्य मार्च मासं यावत दवि लक्ष ग्राम पंचायतेभ्य प्रदातुं लक्ष्यमेकं निर्धारितमस्ति राज्यसभायां एकस्मिन् लिखित पत्रे सूचना प्रविधि मन्त्रिणा रवि शंकर प्रसादेनोक्तं यत् लक्षोत्तर अष्टाविंशति सहस्राधिक ग्राम पंचायता सेवैषा मासस्यास्य सप्तम दिनांकं यावत् सज्जीकरिष्यन्ति

जन परिदेवना राज्यमन्त्रिणा डॉ जितेन्द्र सिंहेनाद्य राज्यसभायां प्रतिपादितं यत् संघ लोक सेवा आयोगस्य परामर्श अष्ट प्रत्याशिनां संयुक्त सचिवस्य पदे निय्क्ति जातास्ति तेनोक्तं यत् एतादृशानि चयनानि निष्पक्ष पारदर्शिता रूपेण भवन्ति

राज्यसभायामदय प्रश्नोत्तरे प्रधानमन्त्री कार्यालये राज्यमन्त्रिणा डॉ जितेन्द्र सिंहेनोक्तं यत् सर्व आहत्य इदं वैफल्यं नासीत राष्ट्रपति राष्ट्रपतिना रामनाथ कोविन्देनोक्तं यत् राष्ट्रस्य उन्नति सम्पलब्ध संसाधनेभ्य प्रभवितया आचरणेन एवं सम्भविता असावद्य राष्ट्रपति भवने राष्ट्रिय प्रतिरक्षा महाविद्यालयीय पाठ्यक्रम सदस्या सम्बोधयति स्म अयं एतेषां सदस्यां ऊनषष्ठि तम पाठ्यक्रमं संबोधयति स्म वृष्टिजलम् जम्म् कश्मीरे केन्द्र शासित प्रशासनेन वृष्टिजलं संरक्ष्य सद्पयोगी करणार्थ बहव योजना समारब्धा

अधिकारिक स्त्रोतोभि शायते यत् कला संस्कृति रिक्थपक्षत भारतीय राष्ट्रिय ट्रस्ट संस्थया योजना एता सज्जीकृता

आगामिनो डिसेम्बर मासस्य षष्ठो दिनांकः आवेदन प्रेषणाय अन्तिमा तिथिर्विदयते इच्छुकाः अभ्यर्थिनः विज्ञप्तेः विस्तृत विवरणार्थ डब्ल्य डब्ल्य डब्ल्यू डॉट न्यूज ऑन एआईआर डॉट कॉम इति अन्तर्जाल स्थानके द्रष्ट्मर्हन्ति

गोआ गोआनगरे भारतीय अन्ताराष्ट्रिय चलचित्र समारोहे इफ्फी इत्यस्मिन् दादा साहेब फाल्के प्रस्कृत म्ख्यात तारकस्य अमिताभ बच्चनस्य चलचित्राणि आकर्षण केन्द्रे वर्तन्ते

राष्ट्रपतिना गोठाभय राजपक्षेण रनिल विक्रमसिंघस्य त्यागपत्राननन्तरमदय महिन्द्रा राजपक्षं प्रधानमन्त्रिपदाय शपथम् अंगीकारितम